भाजपा दलस्याध्यक्षेण अमितशाहेन महात्मा गांधी संकल्प यात्राया श्भारम्भ कृत कृतज़राष्ट्रम् अद्य पूर्व प्रधानमन्त्रिणं स्वर्गीय लालबहाद्र शास्त्रिणम् तदीय जन्मतिथौ सादर संस्मरति

गान्धी जयन्ती कृतज्ञराष्ट्र राष्ट्रपितुर्महात्मगान्धिनः साधैंकशत तमीं जयन्तीम उपलक्ष्य तस्मै श्रद्धाव्जलिं समर्पयति अवसरेऽस्मिन श्रीलंका बांग्लादेश इति द्वौ देशौ समेत्य अशेषेऽपि देशे कार्यक्रमा समनृष्ठीयन्ते प्रधानमन्त्री श्रीनरेन्द्र मोदी नवदिल्ल्यां राजघट्ट स्थे समाधि स्थले संसद भवने च राष्ट्रपित्रे श्रद्धा सुमनांसि समार्पयत् राजघट्टे अद्य प्रातरारभ्य सर्वधर्मप्रार्थनासभापि समायोजता

साबरमती अद्य सायं श्रीमोदी अहमदाबादस्थं महात्म गान्धिनः साबरमत्याथ्रमं सम्प्राप्य तत्र सकृत्प्रयोज्य अभिघवे पदार्थानाम् प्रयोगावसानाभियाने भागं प्रहीष्यति पश्चात् असौ साबरमत्याः परिसरे विंशति सहस्राधिकानां ग्राम प्रम्खाणाम् उपस्थितौ देशं मुक्त शौच मूक्त घोषयिष्यति

भाजपा अध्यक्षेण प्रोक्तं यत् कार्यकर्तार अद्य प्रारभ्य अक्तूबरमासस्य एकत्रिंशत् दिनांकं यावत् अशेषदेशे पदयात्रां विधाय स्वदेशं स्वधर्म सदृशानि जीवन मूल्यानि ग्रामे ग्रामे गृहे गृहे सम्प्रापयिष्यन्ति